महाराष्ट्रम् महाराष्ट्रे अन्वर्तमानं प्रशासन विरचन सम्बद्धं राजनैति संक मधिकृत्य समाचरितं प्रधान मन्त्रिण नरेंद्र मोदिन आध्यक्ष्ये केंद्रीय मन्त्रिमण्डलोपवेशनम् यत्र राजस्य राजनैतिक स्थिते समीक्षणं विहितम्

अत्रान्तरे राज्यपालेन भगतसिंह कोश्यारीवर्येणाद्य राज्ये राष्ट्रपति शासन प्रवर्तनाय प्रस्ताव प्रेषित

देवघरे अद्य एल जे पी दलाध्यक्ष चिरागपासवान घोषणामिमां व्यदधात् प्रत्याशिनां प्रथमा सूचि अद्य प्रकाशयिष्यते इति चिराग पासवानेन भणितम् जावड़ेकर अरविन्द गणपत सावन्तेन केंद्रीय मन्त्रि परिषद त्यागपत्रं राष्ट्रपति रामनाथकोविन्दाय प्रदत्तम् शिवसेनादलनेत्रा सावन्तेन गतदिने केंद्रीयपदात् त्यागपत्रं प्रदत्तमासीत अतिरिक्तप्रभारित्वेन सम्प्रति सुचना प्रसारणमन्त्री प्रकाशजावड़ेकर पदभारमिमं सम्भालयिष्यति प्रधानमन्त्री प्रधानमन्त्री नरेंद्रमोदी एकादशे ब्रिक्स शिखर सम्मेलने भागं भजित्ं ब्राजीलदेशं प्रस्थित ब्राजील रशिया इण्डिया चाइना साउथ अफ्रीका इति पञ्चदेशानां नेतृ समन्वितस्य शिखरोपवेशनस्यास्य विषय वर्तते अभिनव भविष्यार्थं आर्थिक विकास इति

प्रस्थानात् प्राक् प्रधानमन्त्रिणा बी सन्देशे लिखितं यत् असौ ब्रिक्स नेतृभि सार्ध पारस्परिक सहयोग सम्बन् संवर्धनार्थं क्षेत्रीय विकासार्थं च विस्तृत परिचर्चां समीहमानो अस्ति ध्येयमस्ति यत् शिखर सम्मेलनमिदं नवम्बर मासस्य चत्र्दशे पंचदशेति द्वयो दिनांकयो समायोजयिष्यते जम्म्कश्मीरम् जम्मुकश्मीरे श्रीनगरत बारामुलां यावत् रेल सेवा अद्य पुनरारब्धा राज्यस्य विशिष्ठ प्रावधानयुतात् सप्तत्यधिक त्रि शत संख्याकस्य अन्च्छेदस्य अपवारणदिवसात् रेलसेवेयं अवरुद्धा आसीत्

ग्रुनानकदेवस्य जयन्ती प्रकाशपर्वत्वेन आमान्यते ग्रुनानक देवस्याविर्भाव षड्विंशत्युत्तर पञ्चदश शततमे वर्षे कार्तिकमासस्य श्क्ल पूर्णिमायां जातं आसीत् अस्मिन्पावनावसरे समस्तेऽपि देशे नैके कार्यक्रमा समन्ष्ठीयन्ते पञ्जाबे कप्रथलाक्षेत्रस्य सुल्तानपुर लोधी स्थले मुख्य समारोह समायोजित यत्र राष्ट्रपति रामनाथ कोविन्द ग्रुद्वारा बेरसाहिबे ग्रुनानक देवाय नमांसि समर्पितानि अत्रावसरे सम्भाषमाण राष्ट्रपति गुरो नानकदेवस्य आदर्श विचारा संस्मारिता

सप्तचत्वारिंशत् उत्तरैकोनविंशति तमे वर्षे राष्ट्रपिता महात्मागान्धी प्रथमान्तिमवारं दिल्या आकाशवाणीं समागत आसीत्